मार्ग परिवहन राजमार्ग मन्त्री नितिन गडकरी ह्यः लोकसभायां वाहन निष्कासन नीत श्रोषणां कृतवान् भारत इंग्लैण्डयोर्मध्य ञिन्वर्तमानायाः विंशति प्रति विंशति क्षात्रिवक्रीयायाः क्रिक्ट्विस्पर्धा मालिकायाः चत्थी स्पर्धा भारतः विजिता

कोविड् संचेतना सन्देश प्रियाः श्रोतारः कोरोणा महामारी विरुध्य दक्षष एकता भावनया युध्यत अवन्तः अपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड़कल्प स्वीकृर्वन्तु मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

अनक्त संशोधनक भारतीयाभिरक्षा समवायक्षवैदर्शिक निवधिसीमावर्धिष्यता सम्प्रति विधक्किानसारि वैदर्शिक प्रत्यक्ष निवधिसीमा ऊन पञ्चाशत प्रतिशतात् प्रवर्ध्य प्रतिशतं चतुस्सप्तति मिता भविष्यति

प्रदषणोत्पादकानाम् अयुक्तानां च वाहनानां चरणबद्ध रीत्या निष्कासनम् अस्या नीत मुख्यम् उद्दृष्टम् अस्ति

तत्रैव यूपीपीएल इत्यस्य विरोधिदलस्य लोरंस इस्लीअपि नामांकनपत्रं पूरितवान् पथिम बंगाल िधानसभानिर्वाचनानां प्रथमद्वयस्य चरणस्य कृत िचाराभियानं प्रचलति अत्र अस्मिन् वर्षे अष्टस् चरणस् निर्वाचनानि भविष्यन्ति

क्ष्मिमितदानार्थं सम्प्रति विंशति दिनानि एव अवशिष्टानि राज्यर्तिर्वाचनिक प्रचाराभियानानि द्रतगत्या प्रवर्तन्ता अत्रान्तरा नामांकनाय अन्तिमतिथि अद्य अस्ति